यूरोपीय संघस्य त्रयोविंशति सांसदानां शिष्टमण्डलमेकं सम्प्रति जम्मुकश्मीरस्य दिवस द्वयात्मिकायां यात्रायां तत्र सम्प्राप्तमस्ति हंगरी देशस्य बुडापेस्ट नगरे त्रयोविंशतित अध आयुवर्गस्य मल्लेभ्य अनुवर्तमानायां विश्व मल्लनायक स्पर्धा मालिकायां ह्य एकषष्टि किलोग्राम भारवर्गस्य प्रागृपान्त्य चक्रे स्वीयं प्रतिद्वन्द्विनं पराजित्य भारतस्य उदीयमानो मल्ल रवीन्द्र सम्प्रति उपान्त्यक्र सम्प्रविष्ट प्रधानमन्त्रीसउदी अरबिया भारत सउदी अरबिया देशौ रणनैतिक सहभागिता परिषद प्रतिष्ठापनाय आतड़कवाद प्रतिरोध्यभियाने मिथ सहयोगस्य भूयोऽपि वर्धनाय च सहमति प्रकाश्य पारस्परिक हित सम्बद्धै विभिन्न क्षेत्रै सम्बद्धान् द्वादश सन्धीन् हस्ताक्षरै प्रमाणितवन्तौ एष् रणनैतिक सहभागिता परिषत्सन्धिश्च प्रधानमन्त्रिणा श्रीनरेन्द्र मोदिना सउदी अरबियाया युवराजेन मोहम्मद बिन सलमानेन च गतरात्रौ रियाद नगर्या हस्ताक्षरित परिषदियं देशद्रय मध्यगान् सकलानपि सम्बन्धान् समन्नेत् सततं समृद्यता भविष्यति एतदतिरिच्य प्रतिरक्षोर्जवैधव्यापार प्रतिरोध नागरोड़डयनादि सम्बद्धा द्वादश सन्धयोऽपि नेतृ द्वयेन शिष्टमण्डल स्तरे सम्भाषणाऽनन्तरं हस्ताक्षरै प्रमाणिता सहैव उभावपि पक्षौ आतङ्कवादस्य जाति धर्म संस्कृति विशेषै सम्बद्धतां निराकृर्वन्तौ तं विरुध्य सम्भृय संघर्षाय संकल्पं व्यक्तीकृतवन्तौ

देशे विगतेष् वर्षेष् स्वीय प्रशासनस्य स्टार्टअप् इण्डिया सदूशानाम् नूतनोपक्रमाणाम् उपलब्धी गणयन् श्रीमोदी वैश्विक निवेशकान् भारतं समायातूं पुन सोत्साहं समाहृतवान् स गतदिवसे सउदी अरबियाया राजधान्यां रियाद नगर्यां भविष्य निवेशोपक्रम मञ्चं सम्बोधायति स्म महाराष्ट्रम्राजनीति महाराष्ट्रे सद्योनिष्पन्नेष् विधानसभा निर्वाचनेष् खण्डित जनादेश प्राप्ते अनन्तरं तत्र नृतन प्रशासन संरचनामधिकृत्य भाजपा शिवसेना दलयो राजनैतिको गतिरोध साम्प्रतमपि यथावदनुवर्तते तत्र शिवसेनया भावि प्रशासने पश्चातु सार्ध द्वि वर्षयो स्वदलीयं मुख्यमन्त्रि पदमु अभियाच्यते अत्रान्तरे भाजपा दलमु अद्य मुम्बय्यां स्वीय विधायक दलस्य नेतारमु अवचेष्यति तत्र केन्द्रीयमन्त्री वरिष्ठो भाजपा नेता च नरेन्द्र सिंह तोमर दलोपाध्यक्ष अविनाश राय खन्ना च केन्द्रीय पर्यवेक्षकतया समुपस्थितौ भविष्यत